एतदतिरिच्य उपनिर्वाचनक्रमे सप्तदशस् राज्येष् परिव्याप्तेभ्य सातारा समस्तीप्रेत्यनयो लो सभासनयो ए पञ्चाशद विधानसभासनेभ्यश्च मतदानानि सञ्जातानि

ग़हमन्त्री अमित शाहो न्यगादीत् यत् प्रशासनम् आरक्षि ध र्मिणां धार्यस्थलं भद्रतरं विधात्ं तदीय सुस्वास्थाय तत्परिवार संबद्धान् ल्याणप्रदोपायांश्च सुनिश्चेत् यथा ालं पदक्षेपान् विधास्यति

मतदानम् महाराष्ट्र हरियाणयो विधानसभा निर्वाचन प्रसंगे अद्य मतदानानि समनुष्ठितानि मतदानानि प्रात सप्त वादनाद् आरभ्य सायं ाले षड्वादनं यावत् प्रवर्तितानि एतदतिरिच्य उपनिर्वाचनक्रमे सप्तदशस् राज्येष् परिव्याप्तेभ्य सातारा समस्तीप्रेत्यनयो लो सभासनयो एँ पञ्चाशद् विधानसभासनेभ्यश्च मतदानानि सञ्जातानि सायं सार्दधपञ्चवादन पर्यन्तं महाराष्ट्रे त्रिपञ्चाशत दशमलवप्र्वप् चत्वारि षट् मितानि हरियाणायाञ्च ए षष्टि दशमलवपूर्व म् शून्य नव मितानि मतदानानि अभिलिखितानि

सत्रमेनद् दिसम्बर् मासस्य त्रयोदशे दिनाइपे पूर्णताम् एष्यति संसदीय ार्यमन्त्रालयेन लो सभा राज्यसभा सचिवालयौ एतद् विषये संसूचितौ अमित शाहआरक्षिदिवस गहमन्त्री अमित शाहो न्यगादीत् यत् प्रशासनम् आरक्षि ध र्मिणां ार्यस्थलं भद्रतरं विधातं तदीय सुस्वास्थाय तत्परिवार संबद्धान् ल्याणप्रदोपायांश्च सुनिश्चेत् यथा ालं पदक्षेपान् विधास्यति असौ अद्य नवदिल्ल्यां राष्ट्रियारक्षि स्मारप्रे आरक्षि स्मृति दिवसे अभिभाषते स्म

ट्वीट् संदेश माध्यमेन प्रधानमन्द्रिणा प्रोक्तं यत् आरक्षिण तत्परतापूर्वाः दायित्व निर्वहणं विदधति तदीय वीरता च जनान् प्रेरयति श्रीमता मोदिना उक्तं यत् गतवर्षे राष्ट्रियारक्षिस्मार राष्ट्राय समर्पितम् स्मार मिदं तज्ञता प्रेरणा भावबोध विद्यते

नवदिल्ल्यां दल ार्यवाह्यध्यक्षस्य जेपीनड्डा वर्यस्य दल महासचिवस्य अरुण सिंहस्य च उपस्थितौ श्री रेड्डी दलं सम्प्रविष्ट राज्ये प्राक्तने चन्द्रबाबू नायडू सन्नीत शासने श्री रेड्डी मन्त्रिपदे अवर्तत

मूसलाधार वृष्ट्या राज्ये पञ्चासनेभ्यो जायमानानि उपनिर्वाचनानि अपि प्रबाधितानि

इति वार्ताः